अत्रान्तरे श्वः समायोज्यायै मतगणनायै सकलाः अपि प्राक्प्रबन्धाः युद्धस्तरे प्रयूर्यमाणाः विद्यन्ते महाराष्ट्रे हरियाणाया च स्योनिष्पन्नैः मतदानैः सम्बद्धायाः अस्याः मतगणनायाः कृते सक्कल्प्य अष्टचत्वारिशत् केद्राणि निर्वाचनायोगेन प्रकल्पितानि सन्ति